अस्य श्भारम्भ प्रधानमन्त्री नरद्वि मोदी विधास्यति

अद्य सम्रादिवस परिपाल्यता राष्ट्रपतिप्रधानमन्त्रिभ्यां दश्म्रासिभ्य श्भाशया वितरिता अपि च क्रीडावार्तास् ब्रिसवर्त क्रीडांगण चल्यमानायां क्रिक्टर्सपर्धायां ऑस्ट्रलियादश्म पञ्चाक्रीडि हानिप्रस्सर चतुस्सप्तति अधिक द्विशतं धावनांका समर्जिता कोविड ओपनिंग कोरोणामहामार्या विरुद्धं दृष्टी ऐक्यभावनया युद्ध्यत भवन्तोऽपि अस्माभि सह सुरक्षाया उपायत्रयस्य सड़कल्पं स्वीकुर्वन्तु मुखावरकं सन्धारयन्त् सामाजिकदौर्यं परिपालयन्त् पाणिपादं च यथासमयं प्रक्षालयन्त्

कौशलविकासमन्त्रिणा महद्द्विमाथपाण्ड्याः कौशलविकासक्व्विणां विभिन्नप्रशिक्षणार्थिभि सह दृश्यश्रव्यसंवाद प्रणालिकया चर्चा विहिता कौशलविकासयोजनाया चरणऋस्मिन् एकोनपञ्चाशत् अधिक नवशतकोटिरुप्यकै अष्टलक्षप्रशिक्ष्णां प्रशिक्षणस्य लक्ष्यं वर्तत प्रधानमन्त्रिणा नरद्विमोदिना पञ्चदशोत्तर द्विसहस्रतमर्विर्ष कौशलविकासयोजना कार्यक्रमस्य प्रारम्भ विहित सीत्

अस्य श्भारम्भ प्रधानमन्त्री नरद्वि मोदी विधास्यति

राष्ट्रिय प्राथमिकता सूच्यन्सार सूच्यौषधि पप्रथमं स्वास्थ्यकर्मिणां अग्रिमाया पंक्त्या कर्मचारिणां कृत प्रदास्यता सेहैव सूच्यौषध सत्रप्रतिदिनं प्रायश शत जना अन्त िलाभान्विता भविष्यन्ति कोविड अद्यतन दशा कोविडमहामार्या स्वास्थतामिति वरिवर्ध्य पञ्च त्रि दशमलवोत्तर षण्णवति मिता जाता कोविडमहामार्या म्क्तिमार्गे द्र्तगत्या वर्धमानोऽयं दृष्ण अद्यावधि द्विषष्ट्युत्तर सहस्र एकलक्षाधिक एककोटिजना स्वस्था जाता

सैन्यदिवसोत्सव उपलक्ष्य भ्रिषमाण श्रीनरवण अवादीत् यत् षड्यन्त्रकारिभ्य सुदृढं प्रत्युत्तरं प्रदत्तम् अस्माकं सैनिकै गतखीयवर्षे षड्शततोधिका तंकवादिन जम्मूकाश्मीर त्मसमर्पणं कृतवन्त अपि च द्विशततोधिका व्यापादिता तप्पिक्तं यत् संघर्षविरामोल्लंड्घनप्रकरणानि चतुश्चत्वारित् प्रतिशतं यावत् वृद्धि गतानि यत् पाकिस्तानस्य दृष्टमनोवृति सन्दर्शयति

सर्वकारण कृषकै सह वार्ताया नैरन्तर्यम् अखण्डितं स्थापितमस्ति यतो हि सर्वकार समस्याया समाधानमिच्छति

इति वार्ता